अत भारतीयसंसद राज्यविषये विधिनिर्मातृ शक्नोति

जम्मुकश्मीर लोकसभा जम्मूकश्मीरात् सप्तत्यधिक त्रिशतान्च्छेदस्य प्रत्यावर्तनसम्बद्ध विधेयकम् अद्य लोकसभायाम् उपस्थिापितम् सममेव प्रशसनेन ऐषमो जम्मूकश्मीरारक्षण विधेयकम् अपि चचयि उपस्थापितम् जम्मूकश्मीरस्य विधानसभायुतं केन्द्रशासितप्रदेशस्वरूपम् अथ च लद्दाखस्य विधानसभा रहितं केन्द्रशासितप्रदेशस्वरूपं विधेयकस्य प्रावधाने विद्यते केन्द्रीयो गृहमंत्री अमितशाह विधेयकद्वयं प्रास्तौत़ चर्चावधौ गृहमन्त्रिणा स्पष्टीकृतं यत् जम्मुकश्मीरराज्यं भारतस्य अभिन्नाङ्गम् अत भारतीयसंसद राज्यविषये विधिनिर्मात् शक्नोति विषयेऽस्मिन् नियमोलङ्घन सम्बद्धान् कांप्रेसदलस्यारोपान् निराकुर्वता अमितशाहेन प्रोक्तं कांग्रेसदलेन निजस्थिति स्पष्टी कर्तव्या अस्यां चर्चायां सर्वेरपि राजनीतिकदलै सहभागिता कृता श्रीलंका निर्णय श्रीलङ्कीय प्रशासेनोक्तं यत् लद्दाखस्य केन्द्रशासितप्रदेशत्वेन पुनर्घटन निर्णयो भारतस्य आन्तरिकविषयो वर्तते श्रीलङ्काया प्रधानमन्त्री रानिलविक्रमसिङ्घे केस्मिन् सन्देशे प्रावोचत् यत् लद्दाखस्य प्रतिशतं सप्ततिमिता जना बौद्धा सन्ति लद्दाखराज्यं त्रिादृश्यं बौद्धबाहुल्ययुतं प्रथमं भारतीयराज्यं भविष्यति सैन्यप्रमुख जम्मूकश्मीरस्य वर्तमानस्थितिम् आलक्ष्य थलसेनाया उत्तरक्षेत्र प्रमुखस्य जनरल रणबीरसिंहस्य अध्यक्षतायां श्रीनगरे चारविभागस्य सुरक्षाबलानाञ्च उपवेशनम् अभवत् उपवेशने सुरक्षास्थितौ विपरीतप्रभावोत्पादनस्य सम्भावना परिचर्चिता

राहुलगान्धिना प्रोक्त यत् प्रशासनस्य निर्णयेन राष्ट्रियस्रक्षायां गभीरप्रभावो भविष्यति निगदितं च यत् राष्ट्रस्य ऐक्यभावनाया संवर्धनाय जम्मूकश्मीरस्य विभाजनं नैव कर्तव्यम्

गृहमन्त्रिणा अमितशाहेन अद्य लोकसभाया प्रोक्त यत् फारूख अब्दल्लाह निजावासे यथेच्छ निवसति इत प्राक् उसीपी दलस्य सुप्रिया सुले न्यगदत् यत् फारूख अब्दुल्लाह इत्येतस्य अनुपस्थितौ कश्मीरविषायिणी चर्चा अपूर्णा भविष्यति सर्वोच्चन्यायालय अयोध्या सर्वोच्चन्यायालयेन अद्य अयोध्या भूमिविवादस्य प्रत्यह वादश्रवणं प्रारब्धम् विषयेस्मिन् मध्यस्थता प्रयासा विफलीभूता त्रिसदस्यात्मिकाया मध्यस्थता समिते प्रतिवेदने स्वत संज्ञानं स्वीकृत्य प्रधानन्यायाधीशस्य न्यायमूर्ने रंजन गोगोई वर्यस्य अध्यक्षताय्तेन पंचसस्यीय खंडपीठेन निर्णय स्वीकृत सममेव न्यायालयेन राष्ट्रियस्वयंसेवकसङ्घस्य प्राक्तन् विचारकस्य केजिगोविन्दाचार्यस्य वादश्रवणस्य चित्रांकनसम्बद्धा याचिका निराकृता